राजनाथ सिंगापुरम् प्रतिरक्षा मन्त्री राजनाथ सिंहः गतदिने सिंगापुरे तत्रत्यम् उप प्रधानमन्त्रिणं वित्तमन्त्रिणं च हेंग स्वी केट वर्यम् अमिलत् मेलनावधौ भारत सिंगापुरयोः सशस्त्र बलाना मध्ये संयुक्त सखिभ्यास सहभागिता विषये श्रीसिंहेन तोषः प्रकटितः

विधेयकमिद लोकसभाया विगते एव सत्रे अभ्यूपगतमासीत् जम्मूकश्मीर शासकीयपरिषद् केन्द्र शासितेन जम्मू कश्मीर क्षेत्रेण विभिन्नानां शासकीय कार्य विभागानाम् आवण्टनाय एका शासकीया परिषत् संघटिताऽस्ति उप राज्यपालः जीसीमर्मः इमां परिषदम् अध्यक्षयिष्यति एतद् विषयकः शासकीयादेशश्च गतदिवसे तत्रत्येन सामान्य प्रशासन विभागेन प्रसारितः

तनोदीरित यत् देशस्य सुरक्षार्थम अखण्डतायचि जम्म कश्मीरारक्षि बलम अन्यानि सुरक्षा बलानि च अविरत युद्धमिद सम्मुखीकुर्वन्ति